प्रधानमन्त्री नरेन्द्रमोदी प्रावोचत् यत् सर्वकारः देशे विज्ञानस्य प्रौद्योगिकेश्व शिक्षासुदृढीकरणाय कृतसंकल्पो विद्यते केन्द्रसर्वकारस्य कृषकाणां च मध्ये वार्तायाः पञ्चमं चरणं अद्य दिल्ल्याम् आयोक्ष्यते भारतेन कोरोना प्रकोप नियमने प्रशंसार्हा सफलता अधिगतास्ति स्वस्थतामानमपि संवर्ध्य चत्र्णवति दशमलव द्वि शून्य परिमितम् संवृत्तम् अपि च ह्यः कैनबरायां क्रीडितायां विंशतिः प्रतिविंशति क्रिकेट स्पर्धायां भारतेन ऑस्ट्रेलियादलम् एकादशधावनांकैः पराजितम

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य संकल्पं स्वीकृर्वन्त् मुखावरंक सन्धारयन्त सामाजिकदौर्य परिपालयन्त पाणिपाद च यथासमयं प्रक्षालयन्त प्रधानमन्त्री प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रतिपादितम् अस्ति यत् आगामि कतिपयैः सप्ताहैः भारतं कोरोना महामार्याः सूच्यौषधं प्राप्स्यति श्रीमोदी न्यागादीत् यत् वैज्ञानिकाः शीघ्रं सूच्यौषधविनिर्माणं प्रति विश्वस्ताः सन्ति प्रधानमन्त्री नरेन्द्रमोदी प्रत्यपादयत् यत् कोरोना महामार्याः सम्चित उपचाराथं जगत् भारतस्य साहाय्यं समीहते यतोहि अल्पमूल्ये कोरोणा सूच्यौषधानां आपूर्तिः भारतेनैव सम्भवा एतेन महामार्याः रक्षणं भविता असौ ह्यः संक्रमणम् अवलम्ब्य आयोजितं सर्वदलीयम् उपवेशनं सम्बोधयति स्म

अवधेयास्पदं वर्तते यत् चतुर्थचरणात्मिका वार्ता गुरुवासरे आयोजिता आसीत यस्यां कृषकाणां चत्वारिंशत् संघटनानां प्रतिनिधयः कृषि मन्त्रिणा नरेन्द्र सिंह तोमरेण रेलमंत्रिणा पीयूष गोयलेन राज्य वित्तीय मन्त्रिणां सोमप्रकाशेण सह च सम्मेलनं कृतवन्तः कृषि मन्त्रिणा निगदितं यत् सर्वकारः सर्वदा कृषकाणां कल्याणाय उन्नत्यै च प्रयतते कोरोना भारतेन कोरोना प्रकोप नियमने प्रशंसार्हा सफलता अधिगतास्ति इदानीं यावत् नवतिलक्षमिताः जनाः स्वस्था अभूवन्

आरबीआई भारतीय रिजर्व बैंक इत्यस्य अध्यक्षः शक्तिकान्तदासः अवदत् यत् मौद्रिक नीति समितिः वित्तकोषाणां नीतिगत मानं चतुःप्रतिशतम् स्तरे एव स्थापयिष्यति इति सर्वसम्मत्या विनिर्णितम्